जम्मूकश्मीर जम्मुकश्मीरे उपत्यकायां पर्यटकानां गमनागमने प्रवर्तित प्रतिबन्ध अद्य प्रभूति निरसित निर्णयोयं राज्यपालेन सत्यपालमलिकेन सप्ताहारम्भे एव विहित आसीत् अगस्त द्वितीये दिनांके एतत् प्रतिबन्धादेश प्रवर्तित आसीत् अधेयमस्ति यत प्रत्येकस्मिन् वर्षे उपत्यकाभ्रमणाय बृहन्संख्यायां पर्यटका तत्र समायान्ति अपरत्र उच्चमाध्यमिक विद्यालय महाविद्यालयीय परीक्षा राज्ये ऑक्टूबर अन्तिम सप्ताहे समायोक्ष्यन्ते प्रधानमन्त्रि कार्यालये राज्यमन्त्रित्वेन पदासीन जितेन्द्रसिंहो न्यगदत् यत् कश्मीरवास्तव्यानां पण्डितानाम् अपेक्षा केवलं मोदी प्रशासनमेव विद्यते प्रपूरयित् सक्षमम् मोदी चिनफिंग चीन देशस्य राष्ट्रपति शी चिनफिंग महोदय चेन्नई नगरे भारत चीन देशयो मध्ये सम्पत्स्यमाने द्वितीये अनौपचारिक शिखर सम्मेलने सहभागं निर्वोढ़ भारतस्य द्वि दिवसीय यात्रां विधास्यति

समुपवेशने द्विपक्षीय महत्त्वस्य प्रादेशिकै अथ च वैश्विकै विषयै सहैव भारत चीन विकास सहभागितां भूयोऽपि द्रढयितं अपि विचार विनिमयो विधास्यते अस्य समृपवेशनस्य लक्ष्यं देशद्वय मध्ये सर्वोच्चस्तरे संपर्क संस्थाप्य रणनीतिक विषयेष् मंत्र विनियम उभयपार्शिकं सम्बन्धं च संवधयितं उपाय चिन्तनं चास्ति त्रि पूर्वम द्राभ्यां नेतृभ्यां विगते वर्षे अप्रैल मासे वुहान नगरे अनौपचारिक मेलनम अनुष्ठितमासीत राष्ट्रपति राष्ट्रपतिना रामनाथकोविन्देनाद्य महाराष्ट्रस्य नासिके एकस्मिन् विशिष्टसमारोहे सैन्य उड्डयन कोर व्विस्मै ध्वज सम्प्रदत्त अवसरेऽस्मिन महाराष्ट्रस्य राज्यपाल भगतसिंह कोशियारी थलसेनाप्रमुख बिपिनरावत सेनात्रय वरिष्ठाधिकारिणश्च समुपातिष्ठन्त वित्त मंत्री पी एम सी बैंक प्रवव्चनाप्रकरणेन दृष्प्रभावितै अधिकोषलेखाधारकै साकं वित्तमन्त्रिण निर्मला सीतारमणस्य मेलनम् परिष्कारात्मक पदक्षेपा समुत्थापयिष्यन्ते ित्ति समाश्वासनम्

अत्रान्तरे भारतीय रिजर्व बैंकस्य गवर्नर महोदयेन समं विषयं परिचर्च्य यथाशीघ्रं समाधानाश्वासनं प्रदत्तवती सुमन योजना केन्द्रीय स्वास्थ्य परिवारकल्याण परिषदा अद्य नवदिल्यां समायोजितं स्वीयं त्रयोदशोपवेशनम् अत्रावसरे केन्द्रीय स्वास्थ्य परिवार कल्याणमन्त्री डॉ हर्षवर्धनेन विभिन्नराज्यानां स्वास्थ्य मन्त्रिभिश्च साकं समुद्घाटिता समन मि सुरक्षित मातृत्व आश्वासन योजना